विदेशमन्त्री डॉ एस जयशंकर अद्य स्व बांग्लादेशीय समकक्षेन डॉ ए के अब्दुल मोमेन सह संवादं व्यदधात् भारतेन विगत वित्तीय वर्षस्य नवमासे एव सर्वाधिक प्रत्यक्ष विदेशी निवेशराशि समधिगत सम्प्रति सप्तषष्टि अमेरिकी बिलियन डॉलरतोपि अधिक राशि सम्प्राप्त कोवैक्सीन् इति भारतीय सूच्यौषधं त्रिचरणात्मक सम्प्रयोगेष् एकाशीति प्रतिशतमितं प्रभावित्वं प्रादर्शयत् आदेशे अधुनावधि षोडश सहस्त्रोत्तर षट् षष्ट्युत्तर एककोटि मितै जनै कोविड नवदश प्रतिरोधि सूच्यौषध लाभ सम्प्राप्त भारत इंग्लैण्ड देशयो मध्ये क्रीड्यमानाया क्रिकेट् निकषस्पर्धाया अन्तिमद्वन्दवे अद्य नरेन्द्र मोदी क्रिकेट क्रीडांगणे भारतेन क्रीडासमाप्तौ क्रीडकैकहानिपुरस्सरं चत्र्विशति धावनांका समर्जिता सन्ति

अस्मिन्नवसरे प्रधानमन्त्रिणा नरेन्द्र मोदिना एकस्मिन् ट्वीट सन्देशे लिखितं यत् अनेन पदन्यासेन प्रियंग् प्रयोगे वृद्धिर्भविष्यति सममेव कृषि वैज्ञानिकेभ्यो उद्यमिजनेभ्य च शोध नवाचारयो नैका अवसरा समुपलब्धा भविष्यन्ति

वार्ताहरान् सम्बोधयता तेन प्रतिपादितं यत् द्वयोरपि देशयो मध्ये सम्बन्धा भारतस्य प्रतिवेशि प्राथम्य पूर्वीक्षेत्रोन्मुखीय नीत्योः मार्गे प्रचलन्ति

दवावपि देशौ सूरक्षा व्यापार सम्पर्क परिवहन संस्कृति रक्षादिष् नैकेष् क्षेत्रेष् सम्बन्धान् दृढ़ीकर्त् अपि च सर्वान् विषयान् संवादमाध्यमेन निराकर्त् दृढसंकल्पितौ स्तः

सम्प्रयोगेष् एकविंशतिनगराणां प्रायश षड़विंशतिसहस्रमिताः जना युक्ता आसन् इदं सृच्यौषधं भारतबायोटेक्दवारा भारतीय आयर्विज्ञान अनुसंधान परिषद सहभागित्वेन निर्मितम अस्ति

स्वास्थ्य परिवार कल्याण मंत्रालयान्सारि गत चतुर्विशतिहोरास् सार्धचतुर्णवति स्च्यौषधानि प्रदत्तानि कोरोणा महामार्या स्वस्थतामिति अध्ना संवध्य सप्तनवति दशमलव शून्य त्रि मिता अंकिता स्वास्थ्य मन्त्रालयेन प्रतिपादितं यत् षड्विंशति सहस्रोत्तर अष्टलक्षाधिक एककोटिमिता जना स्वस्थीभूता अध्नावधि देशे अध्ना सक्रियरोगिणां संख्या सार्ध त्रिसप्तति सहस्राधिक एकलक्षमिता वर्तते विगतास् चतुर्विशतिहोरासुसप्तदशसहस्रं नवीन सक्रियरोगिणांसंख्या पंजीकृता एवं च नवाशीति रोगिण अनेन संक्रमणेन मृत्युम् उपगता

अस्मिन् सम्मेलने अफगानिस्तान आर्मेनिया ईरान कजाखिस्थान रूस उजबेकिस्तानदेशानां मन्त्रिभि सहभागिता विहिता मन्त्रिस्तरीयम्पवेशनं सम्बोधयता विदेशमन्त्रिणा डॉ एस् जयशंकरेण प्रोक्तं यत् वैश्विक वृद्धे एशियां प्रति सम्म्खीकरणेन क्षेत्रे सम्पर्काय अभूतपूर्व अवसराः उत्पद्यन्ते विदेशमन्त्री अभाषत यत् जनानां वर्धमान आकांक्षाणां पूर्तये क्षेत्रे आधार भूत न्यूनताः दूरीकर्तव्या डॉ जयशंकरेण इदमपि उक्तं यत् भारतसर्वकारेण क्षेत्रीयसम्पर्क महत्त्वम् अवबोधयता चाबहारे निवेशस्य एतिहासिको निर्णय विहित तेनोक्तं यत् अस्यां परियोजनायां किंचित् कालं यावत् चर्चा प्रचलन्ती आसीत् परन्त् दविसहस्र षोडशतमे वर्षे प्रधानमन्त्रिण नरेन्द्र मोदिन ईरानयात्रावधौ अन्ताराष्ट्रिय परिवहन पारगमनानां च कृते वीथिकानिर्माणाय भारत ईरान अफगानिस्तानै हस्ताक्षराणि क़तानि प्रत्यक्ष विदेशी निवेश भारतेन विगत वित्तीय वर्षस्य नवमासे एव सर्वाधिक प्रत्यक्ष विदेशी निवेशराशि समधिगत सम्प्रति सप्तषष्टि अमेरिकी बिलियन डॉलरतोपि अधिक राशि सम्प्राप्त यत् अप्रैलमासात् दिसम्बरमास पर्यन्तं विगतवर्षापेक्षयाचत्वारिंशद् प्रतिशतादपि अधिक वर्तते वाणिज्य एवं उदयोग मन्त्रालयेन प्रतिपादितं यत सर्वकारेण व्यावसायिक श्सरलीकरणाय कृतपरिष्कारै नीतिनिर्माणेनैव अयं परिणाम दरीदृश्यते

इदं सम्मेलनं अद्य जम्मूकश्मीरस्य श्रीनगरे श्रममन्द्रिण सन्तोष गंगवारस्य आध्यक्ष्ये जातम् श्रममन्द्रिणा संसूचितं यत् इदं क्सीदप्रतिशतं भारतीयराजपत्रे प्रकाशितं भविष्यति तदनन्तरं ईपीएफओ सम्बन्धितजनानां कृते धनं सम्प्रेषितं करिष्यति झारखण्ड विस्फोट झारखण्ड राज्यस्य पश्चिमि सिंहभूम जनपदस्य हायाहात् ग्रामस्य समीपे अद्य प्रात द्रापन्नायां विस्फोट घटनायां झारखण्ड जगुआर आरक्षिबलस्य दवौ भटौ वीरगतिम्पगतौ अपि च द्वौ व्रणितौ स्तः घटनायां केन्द्रीय रिजर्व आरक्षि बलस्यापि एको भटो व्रणितोऽस्ति सम्प्रति राज्य आरक्षिबलेन केन्द्रीय रिजर्व आरक्षिबलेन च संय्क्त रूपेण अन्वेषणाभियानं प्रवर्तते परिसीमन योग जम्मू काश्मीर केन्द्रशासित प्रदेशस्य संसदीय विधानसभा निर्वाचनक्षेत्राणां सीम्न निर्धारणाय कार्यकाल एकवर्षाय विस्तारित ऊनविंशत्यधिक दविसहस्राब्दस्य अक्टूबरमासे जम्मू काशमीर राज्यस्य विशेष स्थिते निरसनोपरान्तं राज्यस्य पुनर्धटनाय आयोगस्य स्थापना विहिता आसीत् सर्वोच्च न्यायालयस्य सेवानिवृत्त न्यायाधीशस्य रंजन प्रकाश देसाईवर्यस्य आध्यक्ष्येसंघटितस्य आयोगस्य कार्यक्षेत्रष् जम्मू काश्मीरेण सहितं असम मणिप्र अरूणाचलप्रदेश नागालैण्ड राज्यानि सान्ते येष् जम्म् काश्मीरस्यैव सीम्न निर्धारणाय कार्यकाल विस्तारित

इंग्लैंडदलस्य पर्याय पञ्चोत्तर द्विशत धावनांकान् समर्जय समाप्तः अक्षरपटेलेन चत्वारो क्रीडका गृहीता अश्विनेन च सप्तधावनांकान् दत्त्वा त्रय क्रीडका गृहीता बॉक्सिंग एशियाया सर्वश्रेष्ठ मल्लयोधी पूजा रानी स्पेनस्य कैस्टेलोन मध्ये प्रवर्तमाने पञ्चविंशतितमे बौक्सम् अन्ताराष्ट्रिय बॉक्सिंग प्रतियोगिताया उपान्त चक्रे प्रविष्टा

इति वार्ता